भारत जापान दशौ सामरिक सहयोगं वितानयित्ं वर्धयित्ं च साहमत्यं प्राकटयताम

प्रशासनेन ऐषमो राष्ट्रिय शिक्षा नीत्या प्रारूपे सम्मर्श परामर्श प्रदानस्य समयसीमा समेधिता

उपवेशने श्रीनरेन्द्र मोदिना भारतीय शिष्ट मण्डलस्य समेषां सदस्यानाम उत्साहपूर्वक स्वागतीकरणार्थं शिंजो आबे वर्याय जापान सर्वकाराय च आभार प्रकाशित जनसभा सम्बोधयता प्रधनमन्त्रिणा तत्र प्रतिपादितं यत् श्रीआबे तस्य तादृश प्रथमं मित्रं वर्तते येन सद्य सम्पन्नेष् लोकसभा निर्वाचनेष् प्राप्त विजयस्य कृते तस्मै सर्वादौ वर्धापनानि प्रेषितानि ततश्च वार्ताहैरेस्साकं सम्भाषणावसरे विदेश सचिवेन विजय गोखले वर्येण प्रोदीरितं यद् भारत जापान देशयो मध्ये नीतिगत सम्बन्धानां वितानार्थम् उभावपि देशौ सहमतौ जातौ वर्तेते अम्नोक्तं यत् द्रयोरपि नेत्रो मध्ये भारत जापानयो सम्बन्धानां विभिन्न पक्षेष् परिचर्चा जाता वैश्विक अर्थतन्त्र दृशापि प्रधानमन्त्रिणा अम्ना सह सविशेषं सम्भाषितम् एतद्वि पलायितकानाम् आर्थिकापराधिनां निगडन दूशा महत्त्वपूर्णम् आमान्यते अथ च भ्रष्टाचाररोधि शासन प्रवर्तनार्थमपि महत्त्वाधायि वर्तते सहैव देशद्रयेन सामरिक सहयोग वर्धनार्थमपि साहमत्यं प्रकाशितम् जापान प्रधानमन्त्रिणा वैश्विक व्यापारोन्नतये सृष्ठ वस्तुस्थितीनाम आकलन विषये बलं प्रदत्तम श्रीगोखले प्रत्यपादयत् यदभावपि नेतारौ श्व साप्रेडम उपवेशनम आचरिष्यत ध्यानास्पदं वर्तते यत् मोदी शिखरोपवेशने प्रतिभागार्थम् अद्यैव ओसाकां सम्प्राप्तोऽस्ति श्व प्रधानमन्त्री अमेरिकीय राष्ट्रपतिना सममपि तत्र परिचर्चां विधास्यति जम्मुकश्मीर गहमन्त्री केन्द्रीयो गृहमन्त्री अमितशाह जम्मू कश्मीर श्रीनगरे एकस्मिन्नच्च स्तरीये समुपवेशने राज्यस्य विधि व्यवस्थां सुरक्षास्थितिं च समैक्षत

एनडीए संयुते नेतृत्वे पूर्णबहमतेन पुन प्रशासन रचनानंतरं गृहमन्त्री पदभार स्वीकरणानन्तरं अमितशाहस्य इयं प्रथमा जम्मू कश्मीर यात्रा वर्तते प्रशासनम् आगामि अमरनाथ यात्रां निध्याय तत्रत्यां विधिव्यवस्थां सुरक्षास्थिति च सुतरां सुदुढ़ी करणार्थ सर्वतोदृशा प्रयतते अवधेयमस्ति यदमरनाथयात्रा जुलाई प्रथमायां समारभते गृहमन्त्रिणा एतदतिरिच्य राज्यस्थ अन्येषां वैकासिक योजनानामपि समीक्षा विहिता असौ तत्रत्यै भूरि प्रतिनिधि मण्डलै पंचायत सदस्यै साकमपि अमिलत् गृहमन्त्री आरक्षि निरीक्षकस्य अरसदखानस्य गृहं गत्वा तस्मै सहान्भूतिमपि समार्पयत्

सम्प्रति समयसीमा अस्य मासस्य अवसानं यावदेव वर्तते